इत प्राक नूतन कृषिविधीन समालक्ष्य प्रशासनं कृषक संघटनानि च अन्तरा समायोजिता पञ्चमस्तरीया वार्ता निष्कर्ष रहिता संवृत्ता इति

द्वितीया स्पर्धा भारतेन षड् क्रीडकानां स्रक्षापूर्वकं विजिता समम अनेन विजयेन साकं शृंखलेयं अपि स्वायत्तीकृता भारतेन कोविड आपनिंग प्रियाश्रोतार कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य राष्ट्रं ऐक्यभावनया युध्यता भवन्तोऽपि संक्रमणं इदं परास्तुं सन्नद्वादकं मुखनासिकाच्छाभवन्तु सामाजिकदौर्यानुपालनं पाणिपादप्रक्षालन ञ्च इति उपायत्रयं सर्वदैव अवधारयन्तु यतोहि कोरोना प्रतिरोधी नियमपालनमध्यकुशाग्रबुद्धि परिचायकम् फार्मर्स केन्द्र प्रशासनं कृषक संघटनानि च अन्तरा षष्ठम स्तरीया वार्ता बुधवासरे समायोक्ष्यन्ते इत प्राक नूतन क़षिविधीन समालक्ष्य प्रशासनं कृषक संघटनानि च अन्तरा समायोजिता पञ्चमस्तरीया वार्ता निष्कर्ष रहिता संवृत्ता इति केन्द्रप्रशासनेन प्नरेकवारं कृषका समाश्वासिता यत् क़षकेभ्यो न्यूनतम समर्थनमूल्यं यथावस्थमेव प्रवर्तितम भविष्यति इति केन्द्रीय कृषि मन्त्री नरेन्द्रसिंह तोमरो अवादीत ययत प्रशासनेन कृषकद्वारा सम्त्थापित प्रश्नानां सम्भावित समाधानं समधिगतं अस्ति इति तेन आशा प्रकटिता अस्ति यत कृषका शीघ्रमेव आन्दोलनं समापयिष्यन्ते इति इत प्राक प्रशासनं चत्वारिंशदधिक संघटनानां कृषक प्रतिनिधिभि साकं समायोजिते उपवेशने समाश्वासयत े यत े न्यूनतम समर्थन मूल्यं यथावत भविष्यति अपि च मोदी प्रशासनं क़षकाणां हितं महत्वपूर्ण प्राथमिकतास् विभर्ति इति केन्द्रीय कृषि मन्त्री स्पष्ट्यकरोत यत प्रशासनं विवादानां समाधानाय उच्च्स्तरीय न्यायलयेष्वपि गन्तुं प्रावधानं अपि उल्लेखयिष्यति इति तेन प्रोक्तं यत कृषका विश्वस्ता भवेयु यत मोदी प्रशासनं कृषकाणां हिताय कार्याणि आचरति तेन कृषका विरोधप्रदर्शनावधौ अन्शासनम अन्पालयित्ं अपि वर्धापिता धन्यवादश्च ज्ञापित कृषकेभ्य नरेन्द्र सिंह तोमर केन्द्रीय कृषि मन्द्रिणा नरेन्द्र सिंह तोमरेण प्नस्मारितम यत केन्द्र प्रशासनं कृषक कल्याणाय अस्ति पूर्णतोदृशा प्रतिबद्धम सर्वासां समस्यानां समाधानमपि ईहते केन्द्रप्रशासनम अवधेयास्पदं वर्तते यत केन्द्र प्रशासनं कृषक संघटनानि च अन्तरा अभिनव कृषि विधिम आलक्ष्य हय नव दिल्ल्यां पञ्चमस्तरीया वार्ता समायोजिता केन्द्रीयमन्त्रिणा तोमरेण स्पष्टीकृतं यत ्वार्ताया आगामिक्रम अस्य मासस्य नवमे दिनांके भविता तेन प्रोक्तं प्रशासनं सर्वेष् विषयेष् अवधानं संस्थाप्य समस्यानां समाधानाय प्रयतते तेन प्रोक्तं इंद उपय्क्ततरं भविष्यति यदि कृषकनेतार अपि स्वीय परामर्शान प्रेषयिष्यन्ति इति तेन वार्ताहर सम्मेलने स्पष्टीकृतं यतः न्यूनतम समर्थन मूल्यं कथंकारमपि नैव समाप्तीभविष्यति इति तेन कृषका प्रार्थिता यत ते कोविड नाइन्टीन इति वैश्विक संक्रमण समये अपि च शैत्यकाले वृद्धान बालकान च गृहं प्रेषयन्त् अपि च समाधानाय चर्चा सम्पादयन्तु इति तेन सबलं स्पष्टीकृतं यत मोदी प्रशासनं कृषकहिताय तेषां कल्याणाय च सर्वतोदृशा प्रयतते इति

राष्ट्रपतिना रामनाथ कोविन्देन बाबा साहेब भीमराव आम्बेडकराय तदीय महानिर्वाण दिवसावसरे श्रद्धाञ्जलि समर्पित तेन प्रोक्तं डॉ आम्बेडकर वर्येण साम्य न्यायाधारित समाजाय शासनव्यवस्थायै च प्रयासा विहिता अम्ना प्रोक्तं यत राष्ट्रस्य विधि व्यवस्था वित्त व्यवस्था समग्रविकासरूपरेखा च डॉक्टर आम्बेडकरस्य विचारै प्रेरिता अस्ति उपराष्ट्रपतिना एम वैंकेया नायड्ना अपि डॉक्टर बाबासाहेब भीमराव आम्बेडकरस्य महानिर्वाणदिवसमालक्ष्य चैन्नईस्थ राजकीय भवने एकस्मिन ासामान्य कार्यक्रमे तस्मै श्रद्धाञ्जलि समर्पित अनेन तमिलनाड् राज्यस्य राज्यपालेन वनवारी लाल प्रोहित वर्येण साकं आम्बेडकर वर्यस्य चित्रफलके प्ष्पमाल्यार्पणं अपि विहितम प्रधानमंत्री नरेन्द्रमोदी संविधाननिर्मात्रे महापरिनिर्वाणदिवसावसरे श्रदधाञ्जलिं समार्पयत े तेन प्रोक्तं तदीय विचारा आदर्शाश्च लक्ष्यश जनानां कृते प्रेरणास्पदा सन्ति इति तेन सबलं प्रत्यपादि यत दिसम्बर मासस्य षष्ठो दिवस अयं बाबा साहेब आम्बेडकराय श्रद्धाञ्जलिं समेत्य राष्ट्रं प्रति स्वीय कर्तव्यानां सम्यक निर्वहणं नागरिकरूपेण स्वीय कर्तव्यानां अन्पालनं बोधयति केन्द्रीय गृह मन्त्रिणा अमिशाहेन अपि डॉ भीमरावआम्बेडकराय श्रद्धाञ्जलि समर्पित

कोविड कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य भारतीय संघर्ष प्रवर्धतेतराम भारते अनारतं प्रत्यवाप्तिमितौ परिष्कारो जाजायते देशे संक्रमण प्रतिरोधी वीराणां प्रयासेन प्रत्यवाप्तिमिति त्रि सप्त दशमलवोत्तर चतुर्नवति प्रतिशतं यावत विवर्धिता विगते अहोरात्रे प्राय षड्रिंशत सहसं नूतन प्रकरणानि पञ्जीकृतानि द्विचत्वारिंशत सहस्रजना स्वास्थ्यलाभम अवाप्तवन्त द्वयाशित्यधिक चत्शतं जना कालकवलिता सूच्यन्ते

दवितीया स्पर्धा भारतेन षड् क्रीडकानां स्रक्षापूर्वकं विजिता भारतेन पणकं विजित्य क्षेत्ररक्षणं चितम ऑस्ट्रेलिया दलं च क्रीडनाय समाहूतम ऑस्ट्रेलिया दलेन भारताय नवत्यधिकैकशतं धावनांकानां लक्ष्यं उपस्थापितम ऑस्ट्रेलिया पक्षत मैथ्यू वेड द्वात्रिंशत कन्दुकेषु अष्टपञ्चाशत धावनांकान समार्जयत अपि च स्टीव स्मिथ इत्यसौ अष्टात्रिंशत कन्द्रकक्षेप चक्रेष् षड् चत्वारिंशत धावनांकान समधिगतवान भारतीय कन्द्रकक्षेपक्रीडकेष् नटराजेन क्रीडकदवयं शार्द्रलठाक्र य्जवेन्द्र चहलौ एकम े एकं क्रीडकं क्रीडातो बहिष्कृतवन्तौ प्रत्य्तर भारतेन कन्द्रकदवयम अवशिष्टे सति स्पर्धेयं षड्क्रीडकानां स्रक्षापूर्वकं लक्ष्यमिदं समधिगतम भारतीयं दलं विजयेन साकं विंशति प्रतिविंशति स्पर्धाशंखलामिमाम अपि विजितवत भारतीय पक्षत क्रीडाप्रारम्भकर्तणा शिखर धवनेन धावनांकानां अर्धशतकम समधिगतम हार्दिकपाण्ड्या अविजितरुपेण दविचत्वारिंशत धावनांकान समर्जयत अपि च दलनायकेन विराट कोहलिना अपि चतुर्विशति कन्दुकेषु चत्वारिंशत धावनांकानां योगदानं प्रदत्तम अवधेयास्पदं वर्तते यत ऑस्ट्रेलिया दलं विंशति प्रतिविंशति स्पर्धाया वैश्विक मानांके प्रथमं स्थानं भजते अपि च आगामि वर्ष समायोज्यमाणाय विंशति प्रति विंशति विश्व चषक स्पर्धायै इमा स्पर्धा उभाभ्यां दलाभ्यां महत्वपूर्णा सन्ति तृतीया अन्तिमा च स्पर्धा बुधवासरे नवमे दिनांके भविता क्रिकेट अपि च अस्यां शृंखलायां महदाघातं तदा अवाप्तवत यदा एतत्दलीय सर्वेष् कौशलेष् प्रवीण रविन्द्र जडेजा व्रणितो भूय विंशति प्रतिविंशति स्पर्धामालाया बहिर्भूत अस्य स्थाने शार्द्रल ठाक्र दले सम्मिलितो वर्तते